झारखण्डे मतगणना झारखण्डविधानसभानिर्वाचनानां मतगणना अदय प्रभाते अष्टवा नात प्राप्स्यते आ ौ मतपात्राणां गणना त न् वैद्य्पिक मतानां गणना भविष्यति अवधेयं यतः राज्ये एकाशीति आसनानां कृते पञ्चचरणेष् मत ानानि अभवन प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोधी गत्तिने वेहल्या रामलीला प्राङ्गणे जनसभायां प्रावोचत यत नागरिकता संशोधनविधि राष्ट्रियनागरिकता पञ्जिका च धर्मविशेषस्य जनान ान ानैव प्रभावयिष्यत अम्ना स्पष्टीकृतं च यत सप्रशासनेन असम सम्बदध राष्ट्रियनागरिकता पञ्जिका विषये कोजपि निर्णय नैव स्वीकृत श्रीमोधी भाजपा लस्य धन्यवा सभां सम्बोधयति स्म

उपराष्ट्रपति एमवेंकैयानायडू पुरस्कारान स प्रधास्यति गुजराती भाषाया हिलेरो चलचित्राय सर्वश्रेष्ठचलचित्रप्रस्कार प्रधास्यते आयुष्मानखराना इत्यस्मै अन्धाधन्ध चलचित्राय विक्कीकौशलाय उरी सर्जिकल स्ट्राइक चलचित्राय सर्वश्रेष्ठाभिनेत् सम्मान प्रधास्यते

साम्द्रिक ल्ण्ठका एतेषां जनाना अपहरण कृतवन्त

लस्य राष्ट्रीय कार्यकारी अध्यक्ष जेपी नड्डा यात्रायां नेतृत्वं करिष्यति यात्रा मध्यकोलकाताया स्बोध मलिक चौकत श्याम इति आपण पर्यन्तं भविष्यति भाजपा लं नवीन विधे समर्थने व्यापक कार्यक्रमस्य निर्माणम अकरोत उत्तरप्रदेश हिंसा उत्तरप्र श प्रशासनेन निर्णीतं यत सार्वजनिकसम्पत्ते क्षतिपूर्ति निषेधाज्ञावधौ हिंसाचरणे सहभागिजनेभ्य विधास्यते

गतरात्रौ कटकनगरे क्रीडितायां स्पर्धायां भारतेन वैस्टइण्डीज लं चत्र्णां क्रीडकाणां स्रक्षापूर्वकं पराजितम लनायको विराट कोहली स्पर्धा प्रुष चित भव्यप्र र्शनाय रोहितशर्मा शृङ्खला प्रुष चित